देशे अद्यावधि भूयोऽपि पंचत्रिंशत्लक्षमिता

भवन्तोऽपि अस्माभि सह सुरक्षाया उपाय त्रयस्य सङ्कल्प स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिक दूरतां परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु यावन्नौषधम् तावन्न शैथिल्यम् इदानीं वार्ताः विस्तरेण प्रधानमन्त्री सर्वदलीयमुपवेशनम् प्रधानमन्त्री नरेन्द्र मोदी अद्य समाश्वसयत् यत् सर्वकार कृषिनियमानां प्रकरणं मुक्तबुद्ध्या विचारयति तेनोक्तं यत् सर्वकारस्य निर्णय स्थिरोवर्तते यस्तु द्वाविंशति दिनाड़के आसीत अद्य आयव्ययपत्रक सत्रमुपलक्ष्य आयोजिते सर्वदलीये उपवेशने भाषमाण श्रीमान् मोदी अवोचत यत् केन्द्रीय कृषिमन्त्री कृषकै सह वार्ताभ्य केवलं दरभाषस्यैकस्य दरता भजते षड़विंशतितारिकायां दरापन्नानां घटनानां विषये प्रधानमन्त्री प्राकाशयत् यत् प्रशासनम् उचितं निर्णयं स्वीकरोति प्रधानमन्त्रिण आध्यक्ष्ये समायोजितस्य सर्वदलीयोपवेशनस्य समाप्तौ संसद्रिषयको मन्त्री प्रहलादजोशी अवोचत् यत् सर्वकार स्वकीये तस्मिन् वक्तव्ये स्थिर तिष्ठति यत् एकादशचक्रीय वार्ताया समाप्तौ विहितम आसीत वार्ताहरान सम्बोधयन श्रीमान जोशी अवोचत यत प्रधानमन्त्रिणा उक्तम अस्ति यत् कृषकै अप्रे आगत्य सर्वकारस्य प्रदत्ता विकल्पा ग्रहीतव्या प्रधानमन्त्रिणा महात्मागान्धिने तस्य पृण्यतिथौ श्रद्धाञ्जलि अर्पित राष्ट्रपति राष्ट्रपति रामनाथकोविन्दो अद्य पल्सपोलियोकार्यक्रमस्य प्रथमं चरणं समारभत तेन अस्य कार्यक्रमस्य प्रारम्भ राष्ट्रपतिभवने शिश्न् पल्सपोलियोपाननिरीक्षणेन समं विहित अस्मिन्नवसरे प्रथमा महिला सविता कोविन्द स्वास्थ्यमन्त्री हर्षवर्धन राज्यस्वास्थ्य मन्त्री अश्वनीकमार चौबे च सम्पस्थिता आसन् श्व पोलियो सुच्यौषधीकरणदिवस इति भविष्यति य पोलियो रविवार इति माम्ना अपि ज्ञायते

अयं कार्यक्रम उत्तराखण्डे अवस्थितेन मायावती आश्रमस्थेन अद्वैत आश्रमेण समायोज्यते प्रबुद्ध भारत इति एका मासिकापत्रिका स्वामी विवेकानन्देन षण्णवति अधिक अष्टादशशततमे श्व्रीष्टाबदे प्रारब्धा आसीत

अस्मिन् प्राशासनिक व्यये वृद्धिकारणात् अर्थव्यवस्थाया विकास प्रतिशततायां परिष्कारो भविष्यति वित्तमन्त्री निर्मला सीतारमण गतवासरे लोकसभायाम विंशत्यधिक द्रिसहस्रतमैक विंशत्यधिक द्रिसहस्रतम वर्षीयम आर्थिक सर्वेक्षण प्रस्तृतवती सर्वेक्षणे उक्तमस्ति यत् निर्यातद्वारा प्राशासनिकोपभोगे वृद्धिद्वारा च अर्थव्यवस्थायाम् अपचिति स्थगिता भविष्यति प्रवर्तमान वित्त वर्षे सकलगृहोत्पाद प्रतिशतता सप्त दशमलव सप्त प्रतिशतम् अनुमिता अस्ति संस्कृतवार्ताया संस्करणमिदं इदानीम् आकाशवाणीत प्रसार्यते

कोविड अपडेट देशे अद्यावधि भूयोऽपि पंचत्रिंशत्लक्षमिता अग्रिम पंक्ते स्वास्थ्यकर्मिण सूच्यौषधप्रदानेन लाभान्विता जाता स्वास्थ्यपरिवार कल्याण मन्त्रालयेन प्रतिपादितम यत् विगतास् चतुर्विशतिहोरास्त प्रायश एकसप्तति सहस्राधिक पंचलक्षमिता जना सूच्यौषधदानेन प्रभाविता जाता उत्तरप्रदेशे सर्वाधिकं सूच्यौषध करणकार्यं प्रवृत्तम अस्ति एवञ्च तत्रैव कोविड महामार्या स्वस्थताप्रतिशतता साम्प्रतं संवर्ध्य नव अष्ट दशमलवोत्तर षण्णवतिमिता अड़किता अपि च पंचदश सहस्रं रोगिण स्वस्थीभूता मन्त्रालयेन उक्तं यत् अद्यावधि चत्र्लक्षोत्तर एककोटितोप्यधिका जना स्वस्थीभूय गृहं प्रत्यागता तत्रैव देशे संक्रमितानाम् संक्रिया संख्या प्राय एकपंचाशत् सहम्रोत्तर एकलक्षमिता वर्तते अपस्त्र भारतीय चिकित्सा न्सन्धान परिषद ब्रूते यत् गते अहोरात्रावधौ विभिन्नास् प्रयोगशालास् सार्ध पंचाशत् लक्ष जनानां कोरोना परीक्षणं विहितम्

तेन समाश्वासि यत् संसद इद सत्र मुख्यतया वित्तीय सम्बद्धकार्येभ्य समर्पितं भविष्यति प्रधानमन्त्री मन की बात प्रधानमन्त्री मोदी श्व मन की बात इति कार्यक्रमे देशीयै वैदेशिकैश्च जनैश्च साकं स्वीय विचारान् प्रकटयिष्यति प्रधानमन्त्रिणो मासिक कार्यक्रमस्य इदं त्रिसप्ततितमं संस्करणं भविष्यति अस्य प्रसारणम् आकाशवाण्या द्रदर्शनस्य च सर्वाभि वाहिनीभि विधास्यते

आकाशवाण्या सह संवादे बहरीनदेशस्य राजदूत अब्द्ल रहमान अल कौद प्रावोचत् यत् अनेन भारत बहरीनयो मध्ये सुदृढसम्बन्द्वा ज्ञायन्ते

संस्कृत जगत् सम्बद्धै विभिन्न क्रिया कलापै संबलित सहृदयानां मनो विनोद कर विशिष्ट कार्यक्रम संस्कृत साप्ताहिकी आकाशवाण्या एफ़ एम् गोल्ड प्रवाहिकात प्रति शनिवासरं पूर्वाहि विंशति कलोत्तर एकादश वादनात् प्रसार्यते

गान्धी जयन्ती राष्ट्रम् अद्य राष्ट्रपित्रे महात्मागान्धिने त्रिसप्ततितमे निर्वाणदिवसे श्रद्धाञ्जलिं समर्पयति

महात्मा गान्धी अष्टचत्वारिंशदुत्तर नवदश शततमे ख्रीष्टाब्दे हत आसीत् महात्मागान्धिन पुण्यतिथौ राष्ट्रपति रामनाथ कोविन्द उपराष्ट्रपति वेंकैय्या नायडू प्रधानमन्त्री नरेन्द्रमोदी च राजघाटे समाधि स्थलं गत्वा श्रद्धाञ्जली समर्पितवन्त